जम्मूकश्मीर सामवासरे मध्याहनात् राज्ये सर्वत्र पोस्टपैड इति सेवोत्तर शुल्क प्रदेय सचल द्रभाषसेवा प्नरारप्स्यते

महिलानाम् अन्ताराष्ट्रियमुष्टा मुष्टिस्पर्धायां अष्टाचत्वारिशत् किलोग्रामभारवर्गे भारतस्य मंजूरानी निर्णायकचक्रे प्रविष्टा अपरत्र एमसी मैरीकॉम कास्यपदकं विजितवती प्रधानमंत्री प्रधानमंत्री नरेन्द्रमोदी चीनदेशस्य राष्ट्रपति षी चिनपिंग इत्यनयोर्मध्ये द्वितीया अनौपचारिकशिखर वार्ता सफलतया सम्पन्ना इयं वार्ता सकारात्मक परिदृश्ये अभवत् अद्य नेतारौ तमिलनाड्राज्यस्य मामल्लपुरमे द्वितीयदिवसे अपि वार्ताम् अक्रुताम् तौ ताज फिशरमैन्स कोव इति वसतिगृहे एकहोरापर्यन्तम् एकान्ते विभिन्नेष् विषयेष् चर्चाम् अक्रुताम् एतदनन्तरं शिष्टमण्डलीयस्तरीया वार्ता अभवत् अत्रावसरे विदेशमंत्री एस जयशंकर राष्ट्रीय स्रक्षा परामर्शद अजितडोभाल च उपस्थितौ आस्ताम् श्रीमोदिना प्रोक्तम् यत् वुहान शिखर उपवेशनान्तरं द्वयोदेशयोर्मध्ये संबन्धेष् नवीना गति आगता तेन एतदपि प्रोक्तम्

श्रीमोदिना प्रोक्तं यत् भारत चीन देशौ प्राचीन कालात् एव विश्वस्य आर्थिकशक्ति स्त

प्रशासनस्य प्रवक्ता रोहितकंसल अद्य श्रीनगरे विवरणमिदं उपस्थापयत् राज्ये प्रतिबन्धापकरणदिशि महत्त्वपूर्ण पदक्षेपोऽयं वर्तते

अनुमोक्तं यत् प्रशासनं पारदर्शितापूर्वकं जनेभ्य अन्तर्जालमाध्ययेन सूचनानाम् उपलब्धये कार्यमाचरति गृहमंत्री अद्य केन्द्रीयसूचना योगस्य चतुर्दशं वार्षिकसम्मेलनं सम्बोधयति स्म

द्विसप्ताहावधिकस्य संयुक्त सैन्याभ्यास्योदेश्वं सैन्यद्वयस्य मध्ये सामंजस्यं सुरक्षासंवर्धनम् अथ च आतंकवादस्य निरसनं वर्तते मुष्टामुष्टि महिलानाम् अन्ताराष्ट्रियमुष्टा मुष्टिस्पर्धायां अष्टाचत्वारिशत् किलोग्रामभारवर्गे भारतस्य मंजू रानी निर्णायकचक्रे प्रविष्टा तया उपान्त्यचक्रे थाईलैण्डस्य चुथामत रक्सत चत्वारि एकम् अंकान्तरालेन पराजिता एमसी मैरीकॉम कास्यपदकं विजितवती एकपंचाशत् किलोग्रामभारवर्गे मैरीकॉवर्याया प्रथमम् अन्ताराष्ट्रियं पदकमिदं वर्तते चतुः पंचाशत् किलोग्रामभारवर्गे च जमुना बोरो अद्य क्रीडिष्यति क्रिकेट भारतदक्षिणाफ्रिका दलयोर्मध्ये प्रवर्तमानायां द्वितीयक्रिकेटनिकषस्पर्धायां तृतीयदिने क्रीडावसान समयं यावत् दक्षिणाफ्रिका दलेन प्रथमपर्याये केवलं पंचसप्तत्युत्तरद्विशतं धावनांका समधिगता